प्रोक्तं च सेनात्रयं सम्मिल्य कार्याचरणं विधास्यति प्रधानमन्त्रिणा असौ वर्धापित

बिपिन रावत जनरल बिपिन रावत देशस्य आद्य रक्षा सेवा प्रमुख सीडीएस इत्याख्य पदभारमिदं सम्भालनानन्तरं जनरल रावतेनोक्तं यत् सेनात्रयं सम्मिल्य कार्याचरणं विधास्यति

देशेन प्रथम रक्षा सेवा प्रम्खो लब्ध इत्यभिलक्ष्य प्रधानमन्त्रिणा हर्ष प्रकटित स्वीये ट्वीट् सन्देशे प्रधानमन्त्रिणा असाधारणाधिकारित्वेनोपवर्णित जनरल रावत येन महतोल्लासेन देशसेवाय निजजीवनं समार्पयत् ध्येयमस्ति यत् विगते वर्षे स्वतन्त्रता दिवसोपलक्ष्ये प्रधानमन्त्रिणा रक्षा सेवा प्रमुखपदस्य निर्माणाय घोषणा कृतासीत यस्य महत्वपूर्ण कर्म सेनाया आधुनिकीकरणं भविष्यति

यात्राया प्रथमे चरणे प्रधानमन्त्री कृषि प्रस्कार कार्यक्रमे सहभागं आवक्ष्यति यदन्तर्गतं असौ कृषि क्षेत्रे कृतं महत्वपूर्णं योगदानमालक्ष्य एकविंशतिराज्येभ्य कृषिकर्म पुरस्कारान् प्रदास्यति

बैंगलूरू नगरे अद्य वार्ताभिकरण समं सम्भाषमाणेन इसरो प्रमुखेण एतत्सवंं प्रतिपादितम् जनवरीमासस्य तृतीय सप्ताहात् चिता चत्वारो वाय्सस्याधिकारिण रूसदेशो अन्तरिक्ष यात्रिणां प्रशिक्षणम् प्रदास्यन्ते

जम्मूकश्मीर प्रशासनेन एतदपि सूचितं यत् केन्द्रशासितप्रदेशस्य जम्मूकश्मीरस्य सर्वेषु चिकित्सालयेषु अन्तर्जालीय सेवा अपि प्रवर्तिता ध्येयास्पदं विद्यते यत् कश्मीरात् सप्तत्यधिक त्रि शत संख्याकस्य अन्च्छेदस्य अपवारणान्तरं राज्ये सम्पर्क सेवा विच्छिन्ना आसन् भाजपा केन्द्रीयमन्त्री भाजपादलस्य दिल्या निर्वाचन प्रभारी च प्रकाश जावडेकर अद्य कांप्रेसदलं आम आदमी पार्टीतिदलञ्च विनिन्दितवान् प्रोक्तं च नागरिकता संशोधन विधि विषये दलद्वयेन राजधान्यां मिथ्याप्रचार क्रियते उक्तप्रकरणमधिकृत्य दिल्ली समेत्य अशेषदेशे प्रसृत हिंसाचरणानन्तरं दलद्वयेन शान्ति सन्धारिता नवदिल्यामद्य वार्ताभिकरणासाकं संवादावसरे प्रकाश जावडेकरेण कथितं यत् दिल्यां समोयोक्ष्यमाणं आगामि निर्वाचनं भाजपादलं विकास प्रकरणमधिकृत्य स्पर्धिष्यते